भूयोऽपि पञ्चाशत्सहस्राधिक नवत्रिंशत् लक्षमिताः जना सूच्यौषधप्रदानेन लाभान्विता जाता

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्त् मुखावरकं सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त्

रक्षामन्त्री राजनाथ सिंहः त्रिदिवसात्मकस्यास्य एयरो इंडिया इति प्रदर्शनकार्यक्रमस्य उद्घाटनं विधास्यति अयं कार्यक्रमः प्रथमंवारं कोविड् महामारी कारणाद् संकर विधया आयोज्यते एयरो इंडिया प्रदर्शनकार्यक्रमे प्रतिभागिनः भौतिक रुपेण दृश्यश्रव्यप्रणाल्या च द्विधा द्रष्ट्र शक्यन्ते अयं कार्यक्रमः सर्वथा भारतीय सुरक्षा क्षेत्रे भारतीय मञ्चं प्रदर्शयित्ं आयोज्यते द्विशततोधिकानि सहमतिज्ञापन पत्राणि अस्मिन् स्वीकर्तृ उत्पादकसंस्थाभिः हस्ताक्षरीकरिष्यन्ते राज्यसभास्थगनम् विपक्षिदलै कृषिविधेयक मालक्ष्य कृतकोलाहलकारणात् ह्यः उभयोः सदनयोः कार्य नैकवारं स्थगितम्

ह्यः उद्घोषित सारण्यन्सार दशम कक्ष्यायाः बोर्ड परीक्षाः मई मासस्य चत्र्थे दिनाड्के भाषा परीक्षाभिः प्रारप्स्यन्ते मुख्यविषयाणा परीक्षाः षड्दिनाङ्कतः आंग्लभाषायाः परीक्षया प्रारप्स्यन्ते अन्तिमा कम्प्यूटर् एप्लिकेशन्स् इति परीक्षा जून मासस्य सप्तमदिनाङ्के आयोजयिष्यते

कोरोना अपडप देशे साम्प्रतं कोविड महामार्या स्वस्थ्यताप्रतिशतता सप्तनवति दशमलवशून्यपञ्चमिता अंकिता विगतास् चत्र्विंशतिहोरास् त्रयोविंशत्यधिक चतुश्शतोत्तर त्रयोदशसहस्र्व रोगिण स्वस्थीभूता

केन्द्रिय स्वास्थ्य मन्त्रिणा निगदितं यत् विगते अहोरात्रे प्रायश एकनवतिसहस्राधिकैकलक्ष स्वास्थ्यकर्मिण लाभान्विता सञ्जाता